आगामि विधानसभा निर्वाचनम् आलक्ष्य भारतीय जनता पार्टी दलस्य केन्द्रीय निर्वाचन समिते उपवेशनमेकं गतदिवसे नवेदहल्यां समायोजितम्

सम्मेलनस्य मुख्यो विषय आसीत् आपदात प्न स्वाभाविक यथास्थिति प्राप्त् आधारभूतसंरचना निर्माणम् इति

अखिलमपि विश्वं अन्योन्या श्रितम् इति स्पष्टीभूतम् सम्पूर्णे विश्वे सर्वे जना कोरोना वैश्विक महामारीत दृष्प्रभाविता आसन् सम्प्रति च कोरोना महामार्या उन्मूलनाय अखिलमपि विश्वं प्रतिबद्ध वर्तते

कोरोना महामार्या सम्भावित द्वितीय चरणं निध्याय प्रधानमन्त्रिणा सर्वे उपाया मुख्यमंत्रिभि सह समीक्षिता प्रधामन्त्री एतदवसरे सबल प्रत्यापदयत् यत् कोरोना महामार्या द्वितीयं चरणं समेधते समेधमानानां प्रकरणानां कारणानि अवश्यमेव जेयानि प्रधानमन्त्रिणा भणितं यत् नूतन प्रकरणानां अन्वीषणाय आवश्यका पदक्षेपा उत्थापनीया असौ समसूयचयत् विगते एक सप्ताहे एव देशस्य सप्तति प्रतिशत मितेभ्य जनपदेभ्य सार्ध शत प्रतिशतं महामार्या प्रकरणानि पृष्टिंगतानि प्रधानमन्त्रिणा परीक्षण अवधानता उपचार इति सूत्रस्य परिपालनाय सर्वे समाहूता

अस्मिन् उपवेशने पंश्चिमबंगाले विधानसभानिर्वाचनस्य कृते प्रत्याशिनां नामानि अन्तिमरुपे निर्णीतानि उपवेशनमिदं भाजपादलस्य मुख्यालये समायोजितमासीत् अस्मिन् उपवेशने प्रधानमन्त्री नरेन्द्र मोदी भाजपा दलाध्यक्ष जे पी नड्डा गुहमंत्री अमितशाह अन्ये नैके वरिष्ठनेतारश्च सम्मिलिता अभूवन्

देशवासिभ्य सूच्यौषध सुनिश्चितानन्तरमेव अन्येभ्य देशेभ्य सम्प्रेषितानि अन्ते च क्रीडा वार्ता भारत इंग्लैण्डयो मध्ये अनुवर्तमानाया विंशति प्रतिविंशति क्षेपचक्रीयाया क्रिकेट स्पर्धा मालिकाया चत्थी स्पर्धा अद्य अहमदाबादे नरेन्द्रमोदी क्रीडांगणे समायोजयिष्यते आकाशवाण्या स्पर्धाया अस्या साक्षात् विवरण प्रसारणं साय सार्थ षट् बादनत एफ एम रेनबोअतिरिक्त प्रवाहिनीभि प्रसार्यते